राज्यसभया अद्य ऐषम एस पी जी इति विशिष्ट स्रक्षा समूह संशोधन विधेयकम् अभ्य्पगतम् भाजपा संसदीय दलोपवेशनम अदय राजधान्यां समन्ष्ठितम उपराष्ट्रपति एम् वेंकैया नायडू न्यगादीत् यत् प्रशासनं दिव्यांगजनानां हितं निध्याय समाजं समावेशित्वेन निर्मात् कृतसंकल्पमस्ति

प्नरपि संसदि सांसदानां अन्पस्थिते व्यवहार यथावदेव प्रचलति स्म

उपराष्ट्रपति उपराष्ट्रपति एम् वेंकैया नायड् न्यगादीत् यत् प्रशासनं दिव्यांगजनानां हितं निध्याय समाजं समावेशित्वेन निर्मात् कृतसंकल्पमस्ति

श्रीनायडू अद्य अन्तार्राष्ट्रिय दिव्यांगजन दिवसोपलक्ष्ये नवदिल्यां समायोजिते कार्यक्रमे दिव्यांगजनेभ्य राष्ट्रिय प्रस्कारा प्रदत्ता दिव्यांगजनानां सशक्तिकरणाय संकल्परतेभ्य संघटनेभ्य समाजे उल्लेखनीय योगदानं क्वदभ्यश्च दिव्यांगजनेभ्य प्रस्कारा इमे प्रदत्ता अत्रावसरे उपराष्ट्रपतिना दिव्यांगजनानां अन्येषा समेषामपि वर्गाणां सशक्तिकरणार्थ शिक्षा महत्यावश्यकी प्रतिपादिता

तत्रैव प्रधानमन्त्रिणा चापि दिव्यांगानाम् उज्जवल भविष्य निर्माणार्थं प्रशासनस्य प्रतिबद्धता प्रकटिता नौसेनाप्रमुख नौसेनाप्रमुख एडमिरल करमबीरसिंह न्यगादीत् यत् भारतीय नौसेनया समुद्रे चौर्यकर्मरतानां चत्श्चत्वारिंशत् अवांछिता प्रयासा विफलीकृता विंशत्यधिकैकशतं सम्द्रीय चौराश्च अधिकृता समुद्रीय चौरान् विरूद्धय प्रवर्तिते कार्याचरणावधौ सर्वमेतत् सम्पादितम्

मतदानं च ब्रहस्पतिवासरे समायोक्ष्यते एतदन्तर्गतं पञ्चषष्टि एकशतं प्रत्याशिन स्पर्धन्ते मतदानानां परिणामोद्घोषणा सोमवासरे विधास्यते तेलंगाना तेलंगानायां पश् चिकित्सिकाया सामूहिक दृष्कृति हत्याप्रकरणे विरोधप्रदर्शनानि प्रचलंति अपराधिनां कृते कठोरादपि कठोरदण्डस्य प्रावधानं समीहन्ते प्रदर्शनकारिण

नेपाले नेपाले समन्वर्तमानास् दक्षिणैशिया क्रीडास् भारत पाकिस्तानयोर्मध्ये अन्वर्तमानाया वॉलीबॉल स्पर्धाया निर्णाचकद्वन्द्वे अद्य भारतीय पुरूष वॉलीबॉल दलेन पाकिस्तानवृन्दं पराभूय स्वर्णपदकं विजितम्

इति वार्ताः